रूसदेश जम्मूकश्मीर रूसदेशेन प्रतिपादित यत् जम्मूकश्मीरस्य स्थितो परिवर्तनं तस्य द्वयो केन्द्रप्रशासितप्रदेशयो विभाजनं भारतीयसंविधानस्य अन्तर्गतं कृतमस्ति वार्ताहरानां प्रश्नोत्तरे रूसदेशस्य विदेशमन्त्रालयेन आशाव्यक्तीकृता यत् भारतपाकिस्तानक्षेत्रे स्थिति अस्थिरतां नैव भावयितव्या मन्त्रालयेन इदमपि निगदितं यत् रूसदेश भारतपाकिस्तानयो मिथ सामान्यसम्बन्धानां सदैव समर्थक राजनाथसिंह रक्षामंत्रिणा राजनाथसिंहेनोक्तं यत् रक्षासेवानां पुरूषकमिणश्च स्वकीयानां सन्ततिनां निरीक्षणाय सीसीएल इत्यस्य शिशुसुरक्षा अवकाशस्य लाभ अवाप्स्यन्ते अथ च सेनायां कार्यरतानां महिलाधिकारिण्यश्च अस्मिन् प्रसंगे काचित् मृक्ति प्राप्स्यन्ति

भाजापा इति दलस्य राष्ट्रिय महासचिवेन भूपेन्द्रयादवेन नवदिल्लयां दलस्य मुख्यालये तयो स्वागतीकरणं कृतम् इत प्राकृ ताभ्यां राज्यसभात त्यागपत्रं प्रदत्तम्

अद्य अखिलभारतीयचित्रपटमहामण्डलस्य पुणेस्थं कार्यालयं उद्घाटयता तेनोक्तं यत् चलच्चित्राणि मानवमस्तिष्कं प्रभावायित् सर्वाधिकानि सशक्त माध्यमानि वर्तते श्रीप्रकाशजावड़ेकरेण चलच्चित्रोद्योगाय अध्यर्थित यत् अस्मिनक्षेत्र सम्बद्धेभ्य असंगठितश्रमिकेभ्य प्रधानमन्त्रीनिवृत्तिवेतनयोजना आयुष्मान्भारतयोजनायाश्च लाभ सुनिश्चेतृं प्रायासा विदध्यु

हज़ इत्यस्य सर्वातिशयकार्याय हज़यात्रिण अराफात इति क्षेत्रे एकत्रिता भवन्ति पञ्चदिवसात्मकं ज़ियारत इति तीर्थयात्रा छोऽभवत्

ये यात्रिण अध्ना अराफातइति क्षेत्रस्य उपसमीपं गम्यमाना वर्तन्ते ते तत नमाज़ इति प्रार्थनां विधास्यन्ति अल्लाह इत्यस्मात् क्षमायाचनामपि करिष्यन्ति म्यामां भूस्खलनम् म्यामा इति देशस्य पूर्वीयक्षेत्रे एकस्मिन् ग्रामे भूस्खलनस्य एकस्या घटनाया न्यूनातिन्यून द्वाविशतिर्जना मृता कतिपय जनानां विलुप्ताशंका क्रियते

दिवसोऽयं पारम्परिक जीवाश्म ईंधनस्य विकल्पत्वेन अजीवाश्म ईंधनस्य महत्वस्य जागृतिप्रसारणाय आमान्यते